राष्ट्रिय नागरिक पञ्जिका सज्जीकरणस्य समय सीमा विवर्धन याचनापि विहिता

राजनाथ रक्षामन्त्री राजनाथ सिंह दिवसात्मकीय यात्रायै श्व जम्मू कश्मीरं सम्प्राप्यति तत्र स्वीय यात्रावधौ श्री राजनाथ कारगिल युद्धवीर हतात्म भटेभ्य तेषां विंशतौ वार्षिक्यां श्रद्धाञ्जलि समर्पयिष्यति प्रधान केन्द्रीय पेट्रोलियम प्राकृतिक वाति मन्त्रिणा धमेन्द्र प्रधानेनोक्तं यत् प्रशासनं समावेशि समग्र सतत विकासं च स्निश्चेत् प्रतिबद्धं वर्तते देशं च चत्र्विंशत्यृत्तर द्विसहस्र तम वर्ष पर्यन्तं पञ्चाशत् खर्बुद् डॉलर मित् अर्थव्यवस्थां निर्मातुं प्रयासरतो वर्तते असौ अद्य नवदिल्ल्याम् एनर्जी होराइजन्स प्रर्वमानवर्षाय सम्मेलनमेकं सम्बोधयति स्म प्रवर्तन निदेशालय प्रवर्तन निदेशालयेन धन शोधन प्रकरणे आईएमए ज्वैल्स एतस्य प्रम्खं मोहम्मद मंसूर खानं नवदिल्ल्यां निगृहीत पूर्व प्रवर्तन निदेशालयेन कर्णाटक कथित पोंजी प्रवञ्चना प्रकरणे आईएमए ज्वैल्स विरूद्ध्य धनशोधन प्रकरणं पञ्जीकृतम् आसीत् तदा इदं विरुदध्य निवेशकानां षडविंशति सहस्राधिक परिदेवना पञ्जीक़ता आसन् प्रवर्तन निदेशालय प्रवर्तन निदेशालयेन राष्ट्रमण्डलीय खेल प्रवञ्चनाकाण्ड प्रकरणे स्वेका पावरटेक इंजीनियरिंग प्राइवेट लिमिटेड इत्यस्य कोट्य्त्तर त्रिचत्वारिंशत् लक्ष रुप्यकात्मिका सम्पत्ति धृतास्ति धृतायां सम्पत्यां एतस्यां हरियाणाया मेवात औद्योगिक भूखण्ड समवायस्य नाम्नि ऊनषष्टि लक्ष राशि समाविष्ट असम केन्द्र असम प्रशासने च एनआरसी इति राष्ट्रिय नागरिक पञ्जिका सज्जीकरणस्य समय सीमा ज्लाई एकत्रिंशत् तः अग्रेसरणाय अद्य उच्च्तम न्यायालये याचिकैका पञ्जीकृता केन्द्रेण प्रधान न्यायाधीशं रञ्जन गोगोई वर्यस्य पीठाय प्रोक्तं यत् भारतदेश जगत शरणार्थि राजधानी नैव भवित् शक्नोति उच्चतम न्यायालय अल्पसंख्यक उच्चतम न्यायालयेन अल्पसंख्यक सम्दायस्य घोषणा राष्ट्रिय जनसंख्या गणनामपेक्षा राज्यानां क्रमश जनसंख्या अंकानामाधारे कर्त् याचिकामेकां विषये अटॉर्नी जनरल वर्याय केके वेण् गोपालाय विमर्श याचित भाजपा नेत्रा अधिवक्त्रा च अश्विनी क्मार उपाध्यायेन न्यायालये एषा जनहित याचिका पञ्जीकतास्ति उच्चतम न्यायालय उच्चतम न्यायालयेन दवि नवत्यृत्तर नवदश तमे वर्षे विध्वंसित अयोध्या विवादित संरचना प्रकरणस्य श्रवणरतं विशिष्ट न्यायाधीशम् अद्य प्रभृति निर्णयार्थ समय प्रदत्तः न्यायमूर्ते आरएफनरीमनस्य न्यायमूर्ते सूर्यकान्तस्य पीठेनोक्तं यत् प्रकरणेऽस्मिन् साक्ष्य पञ्जीकरणस्य कार्य षड्मासाभ्यन्तरे पूर्ण भवितव्यम् पीठेन उत्तरप्रदेश प्रशासनं विशेष न्यायाधीशस्य कार्यकालं वर्धित्ं सम्चित आदेश अपि प्रसारित विशेष न्यायाधीश सितम्बर त्रिंशे सेवानिवृत्तो भविष्यति अफगानिस्तान अफगानिस्तानेऽद्य प्रात काब्ल विश्वविद्यालयात् बहि भीषण बम विस्फोटे षड्जना मृता सप्तविंशतिश्च आहता रक्षि दलान्सारेण केनापि आतंकि ग्ल्मेन आक्रमणस्य उत्तरदायित्वं नैवांगीकृतम् घटनायामस्यां वाहनद्वयं अग्नौ भस्मीभूतम् जातम् प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्र मोदिना स्वतन्त्रता दिवसे भाषणाय जनै परामर्शा आमन्त्रिता एकस्मिन् ट्वीट सन्देशे तेन जनै नमो एप्प प्रणाल्यां विशिष्टे प्रारुपे स्वीय विचारा प्रेषणार्थमध्यर्थिता तेन भणितं यत् एते परामर्शा रक्त द्र्ग प्राचीर त स्वतन्त्रता दिवसे भारतीय जना श्रोत्ं शक्यन्ते